प्रधानमन्त्री श्रीनरेन्द्रमोदी महाराष्ट्रे भावि विधानसभा निर्वाचनाथं भाजपा शिवसेनयोः संयुतेः प्रत्याशिनां समर्थने नव नैर्वाचनिकीः जनसभाः सम्बोधयिष्यति

फ्रांसम् राजनाथ प्रतिरक्षामन्त्री राजनाथसिंहः अद्य पेरिसे तत्रत्य राष्ट्रपतिम् इमैनुअल मैक्रोनं सम्मिल्य तत्रत्ये बोडो नगरे प्रथमं राफेल् योद्धविमानम् स्वीकरिष्यति अवसरेऽस्मिन् श्रीसिंहः विजयादशमी पर्व सम्पलक्ष्य शस्रप्जां विधास्यति पूजनाऽनन्तरं सः योद्ध विमाने परीक्षण यात्रामपि समाचरिष्यति

अपरतो महाराष्ट्रेडपि अष्टाशीत्यधिक द्विशत विधानसभासनेभ्यः ऊन चत्वारिशद्तर द्विशताधिकाः त्रि सहस्रम् अभ्यर्भिनः भावि निर्वाचनेभ्यः स्पर्धालुत्वेन निर्धारिताः सन्ति एतस्मिन् राज्य द्वयेऽपि मतदानानि मासस्यास्य एकविंशे दिनांके निर्धारितानि सन्ति मतगणना चतुर्विंशे दिनाड़के भविताः प्रधानमन्त्री जनसभा प्रधानमन्त्री श्रीनरेन्द्रमोदी महाराष्ट्रे भावि विधानसभा निर्वाचनार्थं भाजपा शिवसेनयोः संयुतेः प्रत्याशिनां समर्थने नव नैर्वाचनिकीः जनसभाः सम्बोधयिष्यति तत्रैव भाजपादलाध्यक्षः अमितशाहः अथ च दलस्य ख्यातनेतारः राज्ये संकलय्य अष्टादश जनसभाः सम्बोधयिष्यन्ति कश्मीर समाह्वानम् जम्मू कश्मीरे आतंकवादिनाम् आततिमभिलक्ष्य ततः पर्यटकानां परावर्तन विषयकं राज्य गृह विभागीयं समाद्वानम् एतन्यासस्य दशम दिनांकात् निवर्तयिष्यते उक्तं समाद्वानं विगतस्य ऑगस्त मासस्य द्वितीये दिनांके प्रसारितमासीत्

दशहरा असताम ् उपरि सतां विजयद्योतकं विजयदशमी पर्व अद्य अशेष देशे सोल्लासं समायोज्यते राष्ट्रपतिः श्रीरामनाथकोविन्दः उपराष्ट्रपतिः श्री एम् वेंकैयानायड्श पावनेस्मिन् अवसरे देशवासिनो जनान् हृदा वर्धापितवन्तौ